समप्रदेशे अद्यावधौ कोविड नवदश महामार्याः सूच्यौषधं षष्टि लक्षाधिक सप्तकोटि मितेभ्यः जनेभ्यः वितरितम् अस्ति

केन्द्रप्रशासनेन स्टैण्ड अप योजनान्तर्गतम् पञ्च वर्षेभ्यः षडशीत्यधिक पञ्चशतोत्तर पञ्चविंशतिसहस्रकोटिरुप्यकाणां राशिः स्वीकृतः

तमिलनाड़ केरल पद्दचेरीष् एकचरणात्मकविधानसभानिर्वाचन प्रचारः असम पश्चिमबङ्गालयोःतृतीय चरणस्य प्रचारः च अद्य सायं समाप्तः

अध्नावधि विंशतिः शवाः सम्प्राप्ताः सन्ति

एतस्मिन् एव क्रमे केन्द्रीयः गृहमन्त्री अमित शाहःमुख्यमन्त्रिणा भूपेशबघेलेनचर्चाम् अकरोत्

एतेभ्यः सप्त स्थितिगाम्भीर्येण वायुयानेन रायपुरंनीताः

राष्ट्रपतिः रामनाथ कोविन्दःछत्तीसगढे दुरापन्नायां घटनायांवीरगतिं प्राप्तवतःसैनिकान् प्रति महान् शोकः प्रकटीकृतवान् श्रीमान् कोविन्दः एकस्मिन् सन्देशेवीरगति प्राप्तवतां सैनिकानां परिवारान् प्रति स्वसंबेदनाःप्रकटयन् उक्तवान् यत् अस्मिन् दःखक्षणे सम्प्र्णं राष्ट्रंतैः सह अस्ति प्रधानमंत्री नरेन्द्र मोदी छत्तीसगढेमाओवादिभिः प्रतिसङ्घर्षे वीरगति प्राप्तवतां सैनिकानां परिवारान् प्रति महत्संवेदनाप्रकटितवान् एकस्मिन् ट्वीटलेखे श्रीमान् मोदी उक्तवान् यत् वीरसैनिकानां बलिदानंकदापि न विस्मर्त् शक्यते गृहमन्त्री अमितशाहःराजनाथसिंहः अपि छत्तीसगढेवीरगतिं प्राप्तवद्भ्यः वीरसैनिकेभ्यः श्रद्धाञ्जलिं समर्पितवान्

सहैव योजनेयं पञ्चविंशत्यधिक द्विसहस्रवर्ष पर्यन्तं प्रचलयिष्यति

ह्यःअष्टत्रिंशदाधिक सप्तविंशतिलक्षं जनाः अनेन सूच्यौषधेन लाभान्वितः जाताः

जनानां गमनागमनं न भविष्यति

मतदानम् अप्रैलमासस्य षड्तारिकायां भविष्यति

उप राज्यपालः अकथयत् यत् अनया परियोजनया सम्चित विद्यूत् वितरण भविष्यति

तीव्रतया वर्धमानानां कोविड प्रकरणानां मृतकानां च संख्यां निध्याय बांग्लादेशेन सम्पूर्ण देशे पूर्णपिधानस्य निर्णयो विहित

ढाकायां बांग्लादेशस्य राजमार्ग मन्त्रिणा ओबेदुल कादिरेण निगदितं यत् पूर्णपिधानस्य निर्णय कोरोणा महामार्या द्रतगत्या वर्धमानत्वात् स्वीकृत

बांग्लादेशे शुक्रवासरे एव एकोन सप्तति शत जना रोगेण अनेन ग्रसिता अभवन्